रक्षामन्त्री राजनाथ सिंहः सैनिकान् अवदत् यत् ते मेक इन इण्डिया कार्यक्रमान्तर्गत युद्धकोपकरणानि देशे उत्पादनाय रक्षोद्योगस्य सहयोगं कुर्यात्

नेतार मतदातन् लोभयित्ं प्रयत्नपरा सन्ति वरिष्ठ सुख्यात नेतार निज दलानां प्रचारार्थं अशेष राज्ये जनसभा सम्बोधयन्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् हरियाणात कांप्रेसदलस्य संस्कृति समूला विनष्टा जाता हरियाणाया गोहानायामेकस्यां जनसभायां तेन भणितं यत् राज्ये भ्रातृत्वादस्य स्थानम् अध्ना कार्यसामर्थ्येन कार्य प्रदर्शनिन च गृहीतम्

उपराष्ट्रपति सेवावृत्ति उपराष्ट्रपतिः एम वेंकैया नायडूः प्राशासनिकान् अधिकारिणः प्रोक्तवान् यत् सः तेषां कार्यक्रमाणा लाभं जनेभ्यः सम्प्रापयित्ं प्रयत्नं कुर्वन्त् समान्यान् जनान् अवधार्य कार्यक्रमः प्रारब्धः

राजनाथसैनिकाधीक्षकः रक्षामन्त्री राजनाथ सिंहः सैनिकान् अवदत् यत् ते मेक इन इण्डिया कार्यक्रमान्तर्गत युद्धकोपकरणानि देशे उत्पादनाय रक्षोद्योगस्य सहयोगं कुर्यात्

उत्तरप्रदेश उत्तप्रदेशस्य राजधान्यां लखनऊनगरे कमलेश तिवारी इत्यस्य हत्यायाः अन्वीक्षणार्थं राज्य प्रशासनम् एसआईटी इति विशिष्ट दलस्य निर्माणं अकरोत् अस्मिन् अन्वीक्षणदले लखनऊनगरस्य आरक्षिमहानिरीक्षकः एस के भगतः आरक्षिअधिक्षकः दिनेशप्री एसटीएफ इत्यस्य उपआरक्षि अधीक्षकः पी के मिश्रा सम्मिलिताः सन्ति

हॉकी मलेशियायाः जोहोर बाहरू स्थाने सुल्तान जोहोर चषक हॉकी स्पर्धायां प्रतिदलं गोलांकत्रयेण साम्यत्वं भजते निर्णायकचक्रे अद्य भारतः ब्रिटेन देशेन सह स्पर्धिष्यति